मोदी प्रधानमंत्री नरेन्द्रमोदी चत्वारिंशत् अर्थशास्त्रिभिः अन्य विशेषज्ञैः च साकं विचारविमर्शम् अकरोत् नित्यायोगेन आयोजितोपवशेनस्य विषयः आर्थिकनीतिः भविष्यमार्गः इति अवर्तत प्रतिभागिभिः व्रहद् अर्थव्यवस्था आजिविका कृषिः जलसंसाधनं निर्यातः शिक्षा स्वास्थ्य सम्बद्ध विषयाः आर्थिकद्रष्ट्या परिचर्चिताः

सः तत्र नियंत्रण रेखायाः अन्ताराष्ट्रीय सीमाक्षेत्रे संघर्ष विरामोल्लंघस्य अपि च अवैध प्रवेशं निवारयित् विहित कार्याचरणस्य निरीक्षणं अकरोत् जनरल रावतेन सह उत्तरी कमानस्य प्रमुखः लेफ्टिनेंट जनरल रणबीरसिंहः अपि आसीत् जनरल रावतः सैनिकैः सह सम्भाषणं अपि अकरोत् पश्चिम बंगाल पश्चिम बंगाले भारतीय जनता पार्टीति दलस्य त्रिसदस्यीय संसदीय दलं अद्य उत्तरीय चतुर्विंशतिः परगना जनपदस्य भाटपाड़ायाः निरीक्षणं अकरोत्

प्रर्वकेन्द्रीयमंत्री सांसदश्च एसएस आहल्वालियायाः नेतृत्वे दलं केन्द्रीयमंत्री अमितशाहं प्रति विज्ञप्ति प्रस्तोष्यति

क्रिकेट् इंग्लैण्डदेशे क्रीड्यमानायां विश्व चषक क्रिकेट स्पर्धा मालिकायां गतरात्रौ भारतेन अफगानिस्तानं एकादश धावनाड़कैः पराजितम अपरस्यां स्पर्धायां न्यूज़ीलैण्ड दलेन वैस्टइण्डीज़दलं पश्वधावनांकैः पराजितम्